शीर्षन्यायालयेन राजनीतिक दलानि निर्दिष्टानि यत् स्वीय प्रत्याशिन विरू द्वय लम्बितानां आपराधिक प्रकरणानां विस्तृतं विवरणं तदीय वेबफलके प्रकाशयन्तु इित निर्भया दृष्कृति हत्याप्रकरणे संलिप्तस्य दोषिण मृत्युदण्डेन दण्डितस्य विनयशर्मण दया याचिका उच्चतमन्यायालयेनाद्य निरस्ता

कोरोना देशे कोरोना विषाणो प्रकोपं सम्मुखीकत्तं तस्य संक्रमणं च नियन्त्रितं अद्य नवदिल्यां शिष्टमण्डलानां उच्चस्तरीया मन्त्रणैका सुसम्पन्ना उपवेशनस्य अध्यक्षतां स्वास्थ्यमन्त्री डॉ हर्षवर्धन निरवहत् अत्र उपवेशने विदेशमन्त्री डॉ एस जयशंकर नागर आवास मन्त्री हरदीप सिंह पूरी गृहराज्यमन्त्री नित्यानन्दरायः स्वास्थ्यराज्यमन्त्री अधिनी कुमार चौबे इत्यादयो मन्त्रिणः भागमभजन् मन्त्रणायामु केरले सम्मुखमायाता कोरोना विषाणो दृष्प्रभावस्थितिरपि समीक्षिता मन्त्रिभि अमित शाह केन्द्रीयो गृहमन्त्री अमितशाह प्रावोचत् यत् प्रधानमन्त्रिण नरेन्द्रमोदिन नेतृत्वयुतं सत्तारूढं राष्ट्रिय लोकतान्त्रिक संयुति दलं मादक द्रव्यानां अवैधरीत्या क्रय विक्रयं व्यापारं चावरोद्धुं योजनाबद्ध पदक्रमान् समाचरति असौ अद्य नवदिल्यां आयोजिते द्वि दिवसीये बिम्सटेक सम्मेलने अभिभाषते स्म अस्य सम्मेलनस्य उद्देश्य बिम्सटेकदेशेष् मादकद्रव्यानां अवैध व्यापारस्य नियन्त्रणार्थं योजना विनिर्माणं वर्तते सम्मेलनं सम्बोधयन् गृहमन्त्री न्यगादीत् यत् देशे उक्तवस्तुनाम् आयात निर्यातमभिलक्ष्य राष्ट्रं शृन्यां सहन शक्ति अनुपालयति अमुनोक्त यत् मादक पदार्थ विमुक्त भारत निर्माणाख्यम् प्रधानमन्त्रिण स्वप्न शीघ्रमेव साक्षात्भविता राजनीतिकदल शीर्षन्यायालय शीर्षन्यायालयेन राजनीतिक दलानि निर्दिष्टानि प्रोक्तं च यत् सर्वाण्यपि दलानि स्वीय प्रत्याशिन विरूद्धय लम्बितानां आपराधिक प्रकरणानां विस्तुतं विवरणं तदीय वेबफलके प्रकाशयन्त् हित राजनीतौ अपराधीकरण सन्दर्भे पव्जीकृतां याचिकामवलम्ब्य वादश्रवणकाले शीर्षन्यायालयेन प्रतिपादितं यत् विगतेष् चतृर्ष् निर्वाचनेष् राजनीतौ अपराधीकरणस्य नैकानि प्रकरणानि समधिगतानि महच्चिन्तनीया हि राजनीते एतादृशी स्थिति उच्चतम न्यायालयेन प्रतिपादिता शीर्षन्यायालय निर्भया दृष्कृति हत्याप्रकरणे संलिप्तस्य दोषिण मृत्यदण्डेन दण्डितस्य विनयशर्मण दया याचिका उच्चतमन्यायालयेनाद्य निरस्ता प्रकरणे निर्णयं प्रख्यापयत् त्रयाणां न्यायाधीशानां खण्डपीठं समसूचयत् यत् दिल्ली उपराज्यपालेन गृहमन्त्रिणा चापि एतस्य दया याचिका निरस्तीकरणस्य प्रस्ताव हस्ताक्षरेण प्रमाणित तत्रैव उक्तप्रकरणे संलिप्तेभ्य चतुभ्योंऽपि दोषिभ्य पृथक पृथक मृत्युदण्ड प्रदानसन्दर्भे केन्द्रप्रशासनेन पञ्जीकृतां याचिकां अधिकृत्य शीर्षन्यायलये वादश्रवणं श्वो विधास्यते राष्ट्रपति राष्ट्रपतिना रामनाथकोविन्द वर्येणाद्य भारतीय नौ सेनाया शिवाजी प्रशिक्षण संस्थानं प्रशंसितम्

ऐषमो रेडियो दिवसस्य विषयवस्त् वर्तते रेडियो अथ च विविधता